असौ रियादे भविष्य निवेशोपक्रम मञ्चमपि समुद्रोधयिष्यति प्रधानमन्त्री अरब वार्ताभिकरणै संवादप्रसंगे न्यगादीद यत् पश्चिमैशियाया संघर्षावसानाथं सम्प्रभ्तापारस्परिक आन्तरिक विषयेष् नैव हस्तक्षेप सिद्धान्तानुग्णं संवाद आवश्यक

राष्ट्रपतिना राष्ट्रिय सी एस् आर् इत्यस्मै क्षेत्राय प्रदत्त प्रथम पुरस्कार

भारत सउदी अरबिया प्रधानमन्त्री श्रीनरेन्द्रमोदी सउदी अरबियाया भूपतिना सलमान बिन अब्द्ल्लाजिज अल सउदेन शीर्षनेतृभिश्च समं द्रैपाक्षिकीं मन्त्रणां विधास्यति असौ अद्य सायं रियादे समायोज्यमाने सउदी अरबियाया भविष्य निवेशोपक्रम मञ्चमपि समुद्रोधयिष्यति तत्रैव प्रधानमन्त्री अथ च सउदी अरबियाया युवराजस्य मोहम्मद बिन सलमानस्य च मध्ये समाचरित शिष्टमण्डल स्तरीय मन्त्रणानन्तरं देशद्वयमन्तरा तैलोर्जा प्रतिरक्षादि क्षेत्रेष् सन्धिपत्राणि अपि हस्ताक्षरिष्यन्ते भवन्द्रि ज्ञेयं यत् प्रधानमन्त्री गतरात्रौ सउदी अरबियाया रियादं सम्प्राप्तवान् आसीत् स अरब वार्ताभिकरणै संवादप्रसंगे न्यगादीद् यत् पश्चिमैशियाया संघर्षावसानाथं सम्प्रभुता पारस्परिक आन्तिरिक विषयेष् नैव हस्तक्षेप सिद्धान्तानुग्णं संवाद आवश्यक वर्तते यात्राया प्रमुखमुद्देश्यं देशद्वयमन्तरा भूयोपि सम्बन्ध सुद्दीकरणं विद्यते एतदतिरिच्य प्रधानमन्त्री अद्य रियादे जॉर्डनदेशस्य भूपतिना अब्दुल्ला द्वितीयेन च सार्थं मेलनं व्यदधात् देशयोर्मध्ये व्यापार निवेश शिक्षादि क्षेत्रेषु समवेतत्वेन कार्याचरणं संवादस्य उद्देश्यम् अवर्तता यूरोपीयदेशानां शिष्टमंण्डलम् यूरोपीयदेशानां विंशति संसत्सदस्यानां शिष्टमण्डल मेकम् अद्य अपराह्ने श्रीनगरं सम्प्राप्तम् शिष्टमण्डले इटली ब्रिटेन फ्रांस जर्मनी पौलैण्ड राष्ट्राणां सदस्या सम्मिलिता अवर्तन्ता एतै स्वीयान्भवा सहकृता प्रोक्तं च यदनेन तेभ्य कश्मीरस्थिते अवलोकनावसर प्रदत्त शिष्टमण्डलेन नैकानि उपवेशनानि विधाय जम्मूकश्मीर समेत्य नियन्त्रणरेखायों समग्र सुरक्षाया स्थिति परिज्ञाता राष्ट्रपति राष्ट्रपति श्रीरामनाथ कोविन्द अद्य नवदिल्ल्यां प्रथमं तावत् सी एस् आर् इति राष्ट्रिय निगमित सामाजिकोत्तर दायित्व क्षेत्रे प्रदत्तोत्कृष्ट योगदानाय चितेभ्य समवायेभ्य पुरस्कारान् प्रदत्तवान् अत्रावसरे राष्ट्रपति न्यगादीद् यत् निगमित संस्कृति क्षेत्रे सामाजिक कल्याण भाव योजनम् महत्वमाधत्ते सामाजिक पर्यावरणीय दायित्वं निभालयन्त समवाया इमे आर्थिकरूपेणापि दृढत्वं प्राप्तवन्त सर्वेरपि एतदन्करणीयम् सम्प्रति एते पुरस्कारा प्रतिवर्ष ऑक्ट्रबर द्वितीये दिनांके प्रदास्यन्ते इत्यपि समुद्धष्ट राष्ट्रपतिना

असौ नवम्बर अष्टदश्यां पदगोप नीयतायाया प्रतिज्ञावचनं स्वीकरिष्यति न्यायामूर्ति बोवडे वर्य मुख्यन्यायाधीशपदं सप्तदशमासान् यावत् अलङ्करिष्यति राष्ट्रपतिना रामनाथ कोविन्देन विधिमन्त्रालयस्य अन्शंसां निध्याय नियुक्ते स्वीकृति प्रदत्तास्ति महाराष्ट्र प्रशासनम् महाराष्ट्रे प्रशासन विरचनाय दिनद्वयमेवावशिष्टमु पर भाजपा शिवसेनयो संयुतौ इदानीं यावत् साहमत्य नैव जातम् अस्माकं वार्ताहरेण प्रोक्तं यत् निवर्तमानम्ख्यमन्त्रिणा देवेन्द्र फडणवीसेन निजावासे अनौपचारिके वक्तव्ये प्रतिपादितं यत् शिवसेनया सह प्रशासन विरचनविषये चर्चा प्रवर्तमानास्ति परं भाजपेति दलस्य पक्षतो शिवसेनायै प्रस्तावो नैव प्रेषित इति